भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड़ल्पंक स्वीकुर्वन्तु मुखावरंक सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त्

भारतीय विदेशमन्त्रालयेन पाकिस्तानस्य सम्बन्धिताधिकारी दृढ़शब्दै ज्ञापित यत् एतादृशस्य कृत्यस्य सर्वथा विरोध कर्त्तव्य

कोरोना देशे कोरोणा महामार्या द्वा त्रिंशद्त्तर द्वि शताधिक षट् चत्वारिंशत् सहस्रं नवानि प्रकरणानि प्ष्टिंगतानि एवं अद्यावधि आहत्य अष्ट नवत्य्त्तर पंच शताधिक पञाशत् सहस्रोत्तर नवति लक्षमितानि विषाणो प्रकरणानि समंकितानि

हिमाचल प्रदेश हिमाचलप्रदेशे प्रशासन द्वारा निगदितमस्ति यत् शिमलाजिलायां रविवासरे समस्तापणापिधानं भविष्यति

भोज्यवस्त् औषधापणानि विहाय समस्तानि आपणानि पिहितानि भविष्यन्ति टेनिस अद्य टेनिसक्रीडाया विश्वस्य तृतीयवरीयताप्राप्तः डोमिनिक् थीमः डेनिल मेडवेडीवेन सह निर्णायक स्पर्धायां क्रीडिष्यति थीमः नोवाकजोकोविचं पराजित्य निर्णायक स्पर्धायां प्रविष्टवान् अस्ति तत्रैव डेनिल मेडवेडीवः राफेल नाडालं पराजित्य निर्णायक स्पर्धायां प्रविष्टः अस्ति